भारतेंग्लैण्ड देशयो मध्ये अनुवर्तमानाया क्रिकेट् निकषस्पर्धाया अन्तिमद्वन्द्वे अद्य नरेन्द्र मोदी क्रिकेट् क्रीडांगणे भारतं स्वीयावशिष्ट पाल्यां क्रीडिष्यति

भवन्तोऽपिअस्माभि सहसुरक्षाया उपायत्रयस्यसङ्कल्पंस्वीकुर्वन्तु मुखावरकंसन्धारयन्तु सामाजिकदूरतांपरिपालयन्तु पाणिपादंचयथासमयंप्रक्षालयन्तु

द्वि पाक्षिकविषयेष् अत्र सम्मेलनं सविस्तरं परिचर्चयिष्यते

श्री मोदी दृश्य श्रव्य संवाद तन्त्र माध्यमेन एकविंशत्थिक द्वि सहस्र तमाब्दीय क्रैम्ब्रिज़ एनर्जी रिसर्च एसोसिएट्स वीक इति सम्मेलनम् अपि संबोधयिष्यति

सूच्यौषध प्रदानाभियानमिदं जनवरी मासस्य षोडशे दिनांके समारब्धम्